राज्ये द्वादश विधायकानां पदत्यागानन्तरं राज्ये राजनीतिकोष्णता संवर्धिता

उपवेशनस्य अध्यक्षताम् पूर्वम्ख्यमन्त्री सिद्धारमैया करिष्यति राज्ये कांग्रेसदलस्य नव विधायकानां जेडीएस दलस्य च त्रयाणां विधायकानां पदत्यागानन्तरं राज्ये राजनीतिकोष्णता संवर्धिता बंगल्रुनगरे प्रात कालादेव वरिष्ठकांग्रेस नेतार परस्परं संभाषन्ते वार्ताहरै सह सम्भषणे कांग्रेसनेता मल्लिकार्ज्नखड़गे प्रत्यपादयत् यत् कांग्रेसदलं विधायकानां सम्पर्के विद्यते तेषां त्यागपत्र प्रत्यावर्तनाय च प्रयासा विधीयन्ते

एकस्मिन् ट्वीट सन्देशे तेन लिखितं यत् त्यागपत्रं दलाध्याक्षाय राहलगान्धिने प्रदत्तम अम्ना लोकसभानिर्वाचनेष् दलस्य पराजयस्योत्तरदायित्वं स्वीकृतम् नायडू संस्कृति उपराष्ट्रपति एम वेंकैया नायडू प्रावोचत् यत् भारतीयविशिष्ट प्राचीनज्ञान निधिं प्रसारयित् सांस्कृतिक प्नर्जागरणस्य आवश्यकता वर्तते उपराष्ट्रपति अद्य अनवदिल्ल्यां प्स्तकविमोचनकार्यक्रमं सम्बोधयति स्म अमुनोक्तं यत् तादृश समाजस्य निर्माणावश्यकता विदयते यो हि भारतीयजीवन दर्शनं प्रदर्शयित्ं सक्षमो भवेत् लोकसभाध्यक्ष लोकसभाध्यक्ष ओमबिडला संसदि अधिकतमं विधायिकार्य भवेदिति सबलं प्रत्यपादयत अम्नोक्तं यत् यदि संसदि विधायि कार्याणि भविष्यन्ति चेत् राज्यविधानसभाभ्य उदाहरणानि प्रस्तोष्यन्ते असौ अद्य राजस्थानस्य जयप्रे एकस्मिन् प्रबोधनकार्यक्रमे विधानसभासदस्यान् सम्बोधयति स्म

अद्य नवदिल्ल्यां भाजपेति दलस्य सदस्यताभियाने तया दलस्य सदस्यता स्वीकृता

यात्राया षष्ठे दिने विगतेहिन चत्श्शतोत्तर चत्र्दश सहस्रश्रद्वाल्भि अमरनाथग्हादर्शन प्ण्यम् अवाप्तम्

सदयैव वरिष्ठ कांग्रेसनेतृभि नवदिल्ल्यां विषयेस्मिन् अनौप चारिकोपवेशनं कृतमासीत् स्वीक्रियते यदस्मिन् उपवेशने उत्तराधिकारिण चयनसम्बद्वा रणनीति परिचर्चिता स्यात् अठावले केन्द्रीय सामाजिक न्यायाधिकारिता राज्यमन्त्री रामदास अठावले प्रावोचत् यत् तदीयो मन्त्रालयो दिव्याङ्गजनेभ्य समानावसर स्निश्चेत् कार्यमाचरति असौ गतदिने गौहाट्यां वार्ताहरान् प्रावोचत् यत् विषयेस्मिन् तेन मन्त्रालयस्य विविध योजनानां क्रियान्वयनं समीक्षितम् निगदितं च यत् मन्त्रालय दिव्याङ्गजनानां कल्याणाय प्रतिबद्वोस्ति केन्द्रं वर्षाजलसंग्रह केन्द्रेण सर्वेभ्यो नागरस्थानीय निकायेभ्यो प्रोक्तं यत् वर्षाजलसंचयस्य निरीक्षणाय प्रकोष्ठनिर्माणम् अथ च एकस्य जलनिकायस्य जीर्णोद्वारं क्वन्त् इति केन्द्रीयावासन पौरकार्यमन्त्रालयेन नागर जलसंरक्षण सम्बद्वनिर्देशे प्रोक्तं यदयं प्रकोष्ठ भू जलमात्राया पुनर्पूर्ते निरीक्षणं करिष्यति

उपान्त्यचक्रे कश्यपेन चीनी ताइपे इत्यस्य वांग जू वेई पराजित